भारतीय अन्तरिक्ष अन्सन्धान संघटनस्य इसरो इत्यस्य अध्यक्षेण डॉ के सिवन महोदयेन इसरो संघटनाय ऐतिहासिक चन्द्रयान सफलतार्थ श्भाशया प्रसारिता डॉ सिवन प्रोक्तवान यत वैज्ञानिका चन्द्र धरातले पंचदश महत्त्वपूर्ण परीक्षणानि विधास्यन्ति प्रधानमन्त्री चन्द्रयानम् प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रोक्तं यत ा चन्द्रयानं दवितीयं देशस्य वैज्ञानिकानां त्रिंशदुत्तर कोटि भारतीयानां भरसक प्रयासानाम उपलब्धि वर्तते स्वीय ट्वीट श्रंखलायां श्री मोदिना व्याहृतं यत विषयमिदं बह प्रसन्नतादायकं विदयते यत चन्द्रयान दवितीयमिदं सफलतया प्रक्षेपितमस्ति तेन भणितं यत इदं भारतीय वैज्ञानिकानां क्षमतानां प्रखर उदाहरणं विद्यते एतदतिरिच्य राष्ट्रपतिना उपराष्ट्रपतिना च इसरो वैज्ञानिक दलाय श्भकामना प्रेषिता एन डी ए केन्द्रीय सुचना प्रसारण मन्द्रिणा प्रकाश जावडेकरेणोक्तं यत नरेन्द्रमोदी नेतृत्व यृतं प्रशासनं कृषकाणां सैनिकानां कर्मकराणां व्यापारिणां च हित कल्याणाय प्रयासरतो वर्तते अदय नवदिल्ल्यां वार्ताहरैस्सह सम्वदन प्रकाले एनडीए प्रशासनस्य द्वितीय कार्यकालस्य पंचाशत प्रदिवस पूर्त्यवसरे श्री जावडेकरेणोक्तं यत ाजना साम्प्रतम ाआश्वासिता सन्ति तेन भणितं यत ापंचाशत ादिवसाभ्यन्तरे मोदी प्रशासनेन अनेके महत्वपूर्ण निर्णया विहिता ते आधारभूत संरचना शिक्षा सामाजिक न्याय सदृशेष् क्षेत्रेष् तीव्र गति समायातास्ति एतदतिरिच्य प्रशासनेन पंचाशत दिवसाभ्यन्तरे भ्रष्टाचारं विरूद्धय कठोर दृढोपाया विहिता सन्ति

श्री जावडेकरेणोक्तं यत जलशक्ति मन्त्रालयस्य संरचन चत्र्विशत्य्त्तर दवि सहस्रतम वर्ष यावत प्रत्येकस्मिन गृहे श्द्ध पेयजलस्य सौकर्यार्थ उद्देश्य निर्धारित प्रकाश जावडेकर केन्द्रीय सूचना प्रसारण मन्द्रिणा प्रकाश जावडेकरेणोक्तं यत नरेन्द्र मोदी प्रशासनं समाजस्य सर्वेभ्य वर्गेभ्य कल्याणे बहव प्रयासा विधीयते तेन सूचितं यत प्रशासनेन मार्ग रेलयान क्रीडा क्षेत्रेष् खर्ब्द रूप्यकात्मक राशि निवेशोद्देश्यम अभिस्वीकृत नीति आयोग नीति आयोगस्य उपाध्यक्षेण राजीव कमारेणोक्तं यत वित्तवर्षस्य विंशत्यृत्तर दविसहस्रतम वर्षात े एक विंशत्युत्तर दवि सहस्रतमवर्ष पर्यन्तं भारतस्य विकास दरः अष्ट प्रतिशत तः अधिक भविष्यति संरचनात्मक परिष्काराणा भद्र परिणामा स्निश्चिता

दुर्घटनेयं हफीजपुर क्षेत्रे संजातास्ति